प्रधानमन्त्रिणा प्रथमा नैर्वाचिक जनसभा पूर्वी दिल्ल्यां सम्बोधिता कोरोना संक्रमणं रोद्धुं प्रशासनेन कार्यदलेमकं विरचितम् उपराष्ट्रपतिना एम वैंकैया नायडुना प्रोक्त यत् भारतदेश स्वीयान्तरिक प्रकरणेषु बाह्य हस्तक्षेप नैव सहिष्यति उत्तरप्रदेश आरक्षिदलेन नागरिकता संशोधन अधिनियम विरोधे विहित प्रदर्शनेषु पॉपुलर फ्रन्ट ऑफ इंडिया दलस्य अष्टोत्तर शत जना निगृहीता

प्रधानमन्त्रीनरेन्द्र मोदी अपि पूर्वी दिल्ल्यां नैर्वाचनिक जनसभा सम्बोधयति भाजपा वरिष्ठ नेता गृहमन्त्री च अमित शाह जनान् सम्बोधयति भाजपा अध्यक्ष जेपी नड्डा अपि जनसभा सम्बोधयति कांप्रेसनेता पञ्जाब राज्यस्य मुख्यमन्त्री कैप्टन अमरिन्दर सिंह अपि जनान् सम्बोधयति दिल्ल्या मुख्यमन्त्री आम आदमी पार्टी संयोजक अरविन्द केजरीवाल अपि जनान् आक्रष्ट् सभा आयोजयति सप्तति सदस्यात्मिकाया दिल्ली विधानसभाया कृते शनिवारे मतदानं एकादशे च मतगणना भविता

कार्यले ऽस्मिन् स्वास्थ्य मन्त्री डॉ हर्षवर्धन विदेशमन्त्री एस जयशंकर गृह राज्यमन्त्री जी किशन रेड़डी नागरिकोड़डयनमन्त्री हरदीप प्री च समाविष्टा सन्ति संसद बहि वर्ताहैर सम्भाषणे जी किशन रेड्डिना प्रोक्तं यत् कार्यदलस्यास्य अद्य उपवेशनं भविष्यति

केरल कोरोना केरल राज्ये कोरोना संक्रमणस्य तृतीय प्रकरणं पञ्जीकारितम विषाणो संक्रमित जन चिकित्सालयस्य भिन्ने प्रकोष्ठे स्थापित स्वास्थ्य मन्त्रालयेन प्रोक्तं यत् संक्रमित जनस्य स्थिति स्थिरा वर्तते असौ गहनान्वीक्षणे वर्तते इत प्राकृ केरल राज्यैव कोरोना विषाणो प्रकरणयो पञ्जीकरणं जातम् केरल राज्यस्य स्वास्थ्यमन्त्रिणा के के शैलाजा वर्येण वार्ताहरै स्पष्टीकतं यत् तृतीय प्रकरणं कासारगो जनपदे पब्जीकृत् संक्रमणामिदमालक्ष्य राज्ये आहत्य द्वि सहस्राधिक जना अन्वीक्षणे वर्तन्ते प्रशासनेन इदं रोधुं उपायेष बलं प्रदत्तम संक्रमणस्य पृष्टौ विलम्बेन अपाकतृं संक्रमणस्य प्रारम्भ अलाप्पझा मेडिकल कॉलेज वायरोलॉजी इंस्टीट्यूट इत्यस्मिन् संस्थाने सब्जात संस्थानेऽस्मिन् द्रि शताधिक प्रकरणानां प्रतिदिनं अन्वीक्षणं भवितृं शक्नोति संसद् संसद सदनयो अद्य नागरिकता संशोधन अधिनियम राष्ट्रिय नागरिक पंजिका अन्य प्रकरणानालक्ष्य विपक्षि सदस्यै कोलाहलं विहितम् राज्यसभाया कार्यजातं दिवसे द्वि वादनं यावत् स्थगितम् प्रथम स्थगनानन्तरं द्वादश वादने कार्यजातं पुन प्रारब्धेऽपि विपक्षि दलीय सदस्यै कोलाहलं कृतम् इत प्राक् प्रात कांप्रेस वामपंथीदल तृणमूल कांप्रेस बहजन समाज पार्टी सदस्यै प्रकरणेष् स्थगनादेश प्रदत्त लोकसभायामपि कांप्रेसनेतृत्वे विपक्षि सांसदै तुमुल कोलाहलं विहितम् सदस्यै नागरिकता संशोधन अधिनियम राष्ट्रिय नागरिक पंजिकां विरूद्धय सघोषा उच्चारिता अत्रान्तरे सदने राष्ट्रपते अभिभाषणे प्रस्तृत धन्यवाद प्रस्तावे चर्चा प्रारब्धा उपराष्ट्रपति उपराष्ट्रपतिना एम वेंकैयानायड्ना सबलं प्रतिपादितं यत् भारतदेश स्वीय आन्तरिक प्रकरणेष् बाह्य हस्तक्षेप नैव सहिष्यते तेन प्रबलं प्रोक्तं यत् सुरक्षा रक्षा प्रकरणानि भारतस्य प्रकरणानि सन्ति तेन भणितं यत् भारतदेश स्वीय प्रतिवेशि देशै सह शान्तिपूर्ण व्यवहारे विश्वास करोति

प्रधानमन्त्री प्रधानमन्त्रीनरेन्द्र मोदी लखनऊ नगरे मासेऽस्मिन् पञ्च तारिकायां समायोजितस्य एकादश तमीया प्रवर्तमानवर्षीया प्रदर्शन्या उद्घाटनं विधास्यति एषा प्रदर्शनी नव तारिकां यावत् प्रचलिष्यति